इसरो इति भारतीयान्तरिक्षाऽनुसन्धान संघटनम् अद्य रीसैट टू बी आर् वन् इत्याख्यस्य पृथिवी निरीक्षणोपग्रहस्य प्रक्षपणं विधास्यति

एतद् विध्यक्रिाऽन्तर्गत प्रवर्तमान शताब्द्या चत्दर्दश वर्ष पर्यन्त पाकिस्तान बांग्लादधी अफगानिस्तानादि दध्यक्षी भारतं सम्प्राप्तध्यी हिन्द् जैन बौद्ध पारस्य खैस्त जनध्यी भारतीय नागरिकता प्रदानस्य प्रावधानं विहितमस्ति

सर्वैरपि पञ्च पञ्चाशदत्तर त्रि शत संख्यकै लोकसभा सदस्यै एतद्विधक्तिय समर्थनक्तिदानानि विहितानि

साम्प्रतम् एतत् आरक्षणं त्रिंशदधिक द्वि सहस्र तम वर्षं यावत् प्रवर्धितम्